श्रीमोदी श्व एकादशे ब्रिक्सशिखरसम्मेलने उ स्थास्यति ऐषम सम्मेलनस्य विषयो भावि नवोन्मेषाय आर्थिकवृद्धि वर्तते

अत्रान्तरे प्रधानमन्त्री नरेन्द्रमोदी रूसदेशस्य राष्ट्र तिना ब्लादिमिर तिनेन साकं द्वि क्षीयं सम्भाषणं विधास्यति

महाराष्टप्रशासनम महाराष्ट्रस्य राज्य ालेन अगतसिंहकोश्यारी वर्येण प्रशासनविरचनाय कांग्रेसदलं समाहतम अस्मिन विषये एनसी ी दलाय रात्रौ अष्टवादनं यावत समय प्रदत्त एनसी ी दलस्य महाराष्ट्रप्रम्ख जयन्त ाटिल प्रावोचत यत कांग्रेससंय्त्यै साक विचार्य राज्य ालं मेलिष्यति भाज ादलेन प्रशासनविरचने अनिच्छा प्रकटितासीत शिवसेनया च समयो याचितः रं राज्य ालेन शिवसेनाया याचना निराकता

राज्ये सप्तत्यून्तरत्रिशतान्च्छेदस्य प्रवर्तनकारणेन इयं सेवा प्रतिपिन्धता आसीत ा गतदिने श्रीनगरतो ारामुलास्थात्रं यावत रेलसेवाया रीक्षणं सुचारुतया अभवत उत्तररेलवे विभागस्य अधिकारिणा प्रोक्तं यत प्रेलसेवा अदय प्र्ववत प्रसञ्चालिता भविष्यति

राष्ट्र ति रामनाथकोविन्द ञ्जा स्य क रथला जन दस्थे सुल्तानप्रलोधी ग्रामे समायोक्ष्यमाणं कार्यक्रमं सम्धोधयिष्यति ग्रुणा नानकदेवेन सुल्तान रलोधिस्थले ञ्चदश वर्षाणि यावत ज्ञानमवाप्तमासीत अस्मिन र्वणि अमृतसरस्थिते स्वर्णमन्दिरे गतदिनात नगरकीर्तनं प्रारब्धम न केवलं भारते अ समस्ते जगति तले प्रकाश र्व श्रदधया उल्लसेन च रि ाल्यते

गतशताब्दस्य सप्तचत्वारिंशत्तमे वर्षे नवम् रमासस्य द्वादशे दिने महात्मगान्धिना देशविभाजनसमये हरियाणाया क्रुक्षेत्रे विस्थापिता जना सम्पोधिता आसन प राष्ट्रं प्रति सन्देशं च प्रेषितम आसीत अरुणाचल विधानसभा अरुणाचलप्रदेशस्य विधानसभाध्यक्ष संग दोरजी सोना न्यगादीत ्यत ्अरुणाचलप्रदेश उर्वरक भूम्यै र्याप्तजलाय अन्कुल र्यावरणाय च प्रसिद्धोऽस्ति रं च अत्र कृषका सतत विकासाय महत्त्वप्र्णप्रौद्योगिक्या अनभिज्ञा सन्ति